आई एन एक्स सञ्चार माध्यम भ्रष्टाचार प्रकरणे दिल्ली उच्चन्यायालय द्वारा कांग्रेस नेत्रे पी चिदम्बराय प्रतिभूति निराकरणं विरूध्य सर्वोच्च न्यायालयेन अद्य वादश्रवणं विधास्यते

विश्वबैडमिण्टननायक स्पर्धायां स्वर्णपदक विजयार्थं राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च पीवी सिन्धु वर्धापिता

श्रीमोदी बियारित्ज नगरे पर्यावरण श्र्त्दशा परिवर्तन साम्द्रिक अंकीयपरिवर्तन विषयेष् सत्र सम्बोधयिष्यति यद्यपि भारतं जी सप्त संघटनस्य सदस्य ं नैवास्ति तथापि फ्रांस राष्ट्रपते प्रैनुअल मैक्रोनस्य आमन्त्रणम् अनुसृत्य विशिष्टा तिथित्वेन श्रीमोदी सम्मेलनेऽस्मिन् समुपस्थास्यति फ्रांस संयुक्तारबामीरात बहरीन देशानां यात्रां सम्पाद्य प्रधानमन्त्री गतदिने बियारित्जं सम्प्राप्त जी सप्त सम्मेलानात् पृथक् श्रीमोदिना ब्रिटेन देशीयेन स्वीय समपदस्येन बोरिस जॉनसनेन अथ च संयुक्तराष्ट्र महासचिवेन एण्टोनियो ग्यूटेरीज़ वर्येन सह उपवेशनम् अनुष्ठितम् भारत बहरीन देशौ भारत बहरीन देशौ स्रक्षाक्षेत्रे आतंकवाद प्रतिकाराय च सहयोग संवर्धनार्थं सहमतौ जातौ एकस्मिन् संयुक्त वक्तव्ये आतंकवादिभ्य किव्चिदपि साहाय्य नैव प्रदातम् उभाभ्यां देशाभ्यां विश्वसमुदाय अध्यर्थित देशद्वयेन सांस्कृतिक विनिमय अंतरिक्ष प्रविधि सौरोर्जा क्षेत्रेष् सन्धि पत्र हस्ताक्षरितम्

द्वयो देशयोर्मध्ये प्रतिरक्षा क्षेत्रे सहयोगम् अस्य यात्राया उद्देश्यमस्ति स्वीय यात्रावधौ वाय्सेना प्रमुख बैंकॉक नगरे एकोन विंशत्यधिक द्विसहस्रतम वर्षीये भारत प्रशांत क्षेत्रीय प्रतिरक्षा प्रमुखाणां सम्मेलने समुपस्थास्यति

अल्पसंख्यक कार्यमन्त्री मुख्तार अब्बास नकवी आकाशवाणीम् असूचयत् यत् सप्तत्यधिक त्रिंशततमानुच्छेद कारणात् वहव्य विकास परियोजना जम्मू कश्मीरस्य जनता प्रति नैव सम्प्रप्ता सन्ति

स्पर्धा विजेत्री सा प्रथमा भारतीय क्रीडिका सब्जाताऽस्ति जापानस्य जोजोमी ओकूहारा तया एकविंशति सप्त एकविंशति सप्त त्रि अन्तरालाभ्यां केवल षट्रिशत् मिनटात्मके अवधौ गतरात्रौ स्विट्जरलैण्डस्य वसेल नगरे पराजिता राष्ट्रपतिना रामनाथ कोविन्देन उपराष्ट्रपतिना एम वेंकैया नायडुना प्रधानमन्त्रिणा नरेन्द्रमोदिना च विजयार्थं सिन्धु वर्धापिता

अनेन विजयेन सहैव अस्यां स्पर्धा श्रृंखलायां भारतेन शून्यं विरुध्य एकेन अंकेन अप्रेसरत्वम् अधिगतमस्ति रहाने स्पर्धाप्रुषो घोषित